छत्तीसगढ़े सुकमा जनपदे गतसायं सुरक्षाबल माओवादि संघर्षे त्रयः माओवादिनः व्यापादिताः भारत दक्षिणाफ्रीकादेशयोः मध्ये विंशतिं प्रति विंशतिक्षेपचक्रीया अन्ताराष्ट्रिय क्रिकेट् स्पर्धा मालिका धर्मशालायाम् अद्य प्रभृति समारभते गजरातम्राजनाथ रक्षामन्त्री राजनाथसिंहः प्रत्यपादयत् यत् पाकिस्तानेन आतड़कवादस्य समर्थनं त्यक्तव्यम् अन्यथा पाकिस्तानस्य विघटनं केनापि निराकत्त् न शक्ष्यते

तेन एतदपि प्रोक्तम् यत् भारतदेशे सर्वेडपि जनाः स्रक्षिताः सन्ति

राष्ट्रपतिस्विट्ज़रलैण्डम् राष्ट्रपतिना रामनाथ कोविन्देन स्विट्जरलैण्डे विलेन्युवे नगरे महात्म गान्धिनः कांस्य प्रतिमा अनावृता श्री कोविन्दः व्यापारिक सांस्कृतिक संबन्धं संवर्धयित् सम्प्रति स्विट्जरलैण्ड देशस्य पञ्चदिवसीय यात्राया निरतोऽस्ति विदेश सचिवः विजयगोखले षोडशे विदेश कार्यालयीय परामर्शाधिवेशने विदेश सचिवः सहभागाय अद्य दिवसद्वयव्यापिन्याम् ईरान यात्रायां प्रतिष्ठते विदेशमन्त्रालयस्य प्रवक्ता रवीश कुमारः अवोचत् यत् श्रीगोखले ईरानस्य विदेशसचिवेन सैयद अब्बास् अराधचिना सह मन्त्रणा विधास्यति श्रीमता कुमारेण प्रोक्त यत् ईरानस्य विदेशमन्त्रिणा जावेद जरीफेन सममपि विदेशमन्त्रिणः मेलनं संभाव्यते

आरक्षिभिरुक्तं यत् संघर्षोऽयं सायं षड् वादने चिन्तलनारारक्षि स्थात्रान्तर्गतां टडमेटला मुकरम नालिकां निकषा एकस्मिन् वने समारब्धः नैकानि शस्राणि संघर्ष स्थलात् अधिगतानि सन्ति

वाइट् हाउस् विज्ञप्त्यनुसारि अफग़ानिस्तान पाकिस्तान क्षेत्रयोः अमेरिका प्रवर्तिते आतङ्कवाद रोध्यभियाने एषः लादेन पुत्रः निहतः

तिसुणा स्पर्धाना शुङ्खलायाः अस्याः आद्या स्पर्धा अद्य सायं सप्त वादनात् समारप्स्यते आकाशवाण्या अस्याः स्पर्धायाः साक्षाद्विववरण क्रमशः हिन्द्याङ्ग्ल भाषयोः प्रसारविष्यते साक्षाद्विवरणमेतत् एफ्एम्रेनबो वाहिन्या अतिरिक्त प्रणालिकाभिश्च साय सार्ध षड् वादनात् श्रोतु शक्ष्यते